सः तत्र एकादशे ब्रिक्स शिखर संमेलने भागमावहत् ब्रिक्स व्यापार मश्चं समबोधयत् ब्रिक्स व्यापार परिषदा न्यू डिवेलपमेण्ट बैंकेन च समं विचार विनिमयं च व्यदधात् स्वीये सद्यस्तने ट्वीट् सन्देशे प्रधानमन्त्रिणा ब्राजीलस्य ब्रिक्स संमेलनं नितरां सफलं वर्णितम्

सः गतदिवसे तत्र जम्मू प्रखण्ड गते रियासी जनपदे तलवाड़ायां राज्यारक्षि कार्मिकाणाम् एकस्मिन् कार्यक्रमे स्वीयोद्वारं प्रकटयति स्म कर्णाटकम भाजपा उपनिर्वाचम कर्णाटके आगामिनो डिसेम्बर मासस्य पश्चमे दिनांके निर्धारितानां विधानसभोप निर्वाचनानां क्रते भाजपा दलेन स्वीय त्रयोदश प्रत्याशिनां नामसूची गतदिवसे समुद्घोषिता कांग्रेस जेडीएस् दलयोः इमे विधायकाः विगत दिवसेष् तत्रत्य विधानसभाध्यक्षेण अयोग्याः घोषिताः आसन् यदनन्तरम् इमे भाजपा दलं प्राविशन् महाराष्ट्रम राजनीतिः अपरतो महाराष्ट्रे कांग्रेस नेता विजय वाड़ेत्तिवारो ब्रूते यद् राज्ये नूतन प्रशासन संरचनायै कांग्रेस राष्ट्रवादिकांग्रेस शिवसेना दलैः सामान्य न्यूनतम कार्यक्रमः प्रायशो निर्णीतोऽस्ति एतच्च वक्तव्यं तेन ह्यो मुम्बय्यां दल त्रयस्य शृंखलित मन्त्रणोप वेशनेभ्यः अनन्तरं प्रकाशितम्

पश्चिमबंगालः केन्द्रीयवृन्दम् पश्चिम बंगाले नातिचिरं समापतितेन बुलबुल चक्रवातेन दुष्प्रभावितेष् क्षेत्रेष् क्षतीनामाकलनाय केन्द्रीयं पर्यवेक्षक वृन्दमेकम् अद्य तत्र प्रयाति गतदिवसे तत्प्रदेशस्य मुख्यमन्त्री ममता बनर्जी सकलानपि जनपद प्रशासकान् सांसदान् विधायकांश्च समाकार्य चक्रवातोत्तर कालिकीं प्रदेशस्थितिं सविस्तरं समैक्षत